भारतीया नागरिका विदेशमन्त्रालयेन परामृष्टा यत् इराकस्य असुरक्षितपञ्चप्रान्तेतरक्षेत्रेषु यात्रा विधेया

जामिया मिल्ल्या इस्लामिया दिसम्बरमासस्य पञ्चदशदिने जाते नागरिकतासंशोधनविधे विरोधे दिल्ल्यारक्षिबलै सम्प्रस्तृतम आरोपपत्रमा आरोपपत्रे अस्मिन् सीसीटीवी फुटेज इति दृश्यश्रव्यसामप्रिभि कॉल डिटेल रिकार्ड इति दूरभाषीयध्वन्यंकनै सहित प्रत्यक्षदर्शिनां शताधिकजनानां मतानि संलग्नानि सन्ति दिल्ल्यारक्षिबलेन न कस्यचिदपि छात्रस्य अभिमतं स्वीकृतं परब्व हिंसाचरणाय शर्जील इमाम इत्यमुं दोषित्वेन निर्धारित हिंसानिरीक्षणे प्रकटितं यत् घटनास्थले या गोलिका प्राप्ता ता थ्री प्वाइंट टू एम एम पिस्टल इत्यस्या भुषुण्डिकाया सन्ति आरक्षिबलै अधुना यावत् प्रकरणे अस्मिन् जामियाक्षेत्रात् अष्टौ जना न्यू फ्रेंड्स कॉलोनी इति क्षेत्रात् नवजनाश्च निगडीकृतास्सन्ति विदेशमन्त्रालय विदेशमन्त्रालयेनोक्तं यत् भारतीयनागरिका अधुना इराकदेशस्य नीनवे सलाउद्दीन दीयाला अनबर किरक्क इति प्रान्तपञ्चविरहितं अन्यस्थानेष् यात्राविचार कुर्यू यात्रापरामर्शे मन्त्रालयेनोक्तं यत् एते पञ्चप्रान्ता असुरक्षितास्सन्ति कोरोना मानेसरक्षेत्रम् हरियाणाया मानेसरस्थिते सैन्यशिविरे चीनदेशात् वुहाननगरात् भारत नीता सर्वेऽपि विंशत्युत्तरद्विशतं जना कोरोनाविषाणुना असंक्रमिते सति अद्य अवकाश प्राप्ता भविष्यन्ति अपि च नवदिल्ल्या छावलास्थिते आईटीबीपी इति शिविरे असंक्रकिता चत्श्शतं जना द्य एव विमुक्ता आसन् एतेष् सप्तजना मालदीवदेशात् आसन्

कार्यक्रमोऽयं मासिककार्यक्रमस्य द्विषष्टितमायां श्रंखलायां वर्तते श्रीमोदीना देशवासिन अध्यर्थिता यत् ते स्वकीयान् विचारान् प्रदद्यु एकम् अष्ट शून्ये शून्ये एकम् एकम् एकम् सप्त अष्ट शून्ये शून्ये च इति दूरभाषीयांकानि पिधाय जना प्रधानमन्त्रिणं स्वकीयानि मतानि ध्वन्यंकनं विधाय अपि संप्रेषयितुं समर्था सुलभाश्व वर्तन्ते

वित्तमन्त्रिणा सुरेश सखन्ना इत्यनेन षष्ट्युत्तराष्ट्रशताधिकद्वादशसहस्रोत्तरपञ्चलक्षकोटिरूप्याकाणां आयव्ययपत्रं प्रकटितम् मुख्यमन्त्रिणो योगी आदित्यनाथस्य प्रशासनस्य इद चतुर्थम् आयव्ययपत्र वर्तते